नवीनाशिक्षानीति शीघ्रमेव घोषयष्यिते शिक्षासंस्थानेषु प्रशिक्षुतापाठ्यक्रमाणि च आरप्स्यन्ते भविष्यति पञ्चपुरात्वस्थलनां विकास अथ च भविष्यति विकास उड्डयनयोजनान्तर्गतं एकशतं विमानपत्तनानां द्वाविंश्त्युत्तरद्विसहस्रतमं वर्ष यावत् कृषकाणामायद्विगुणीकरणाय प्रतिबद्धं प्रशासनम् चतुर्विंशत्युत्तरद्विसहस्रतमं वर्ष यावज्जनौषधिक्रेन्द्राणि च आरप्स्ते सर्वेषु जनपदेषु

लोकसभायां निर्मलासीतारमण आयव्ययसंकल्पनाप्रस्तृतीकरणे व्यक्तिगतायकरश्रेणी सरलीकरणाय घोषणां कृतवती तयोक्तं यत् पत्रस्य त्रयो प्रमुखा भागा एतेष् प्रथम वर्तते आकांक्षी भारतम् अर्थात् शिक्षास्वास्थ्यजीविकाक्षेत्रोपरि विशिष्टावधानम् द्वितीय विद्यते सर्वेषां कृते आर्थिको विकास तृतीयर्च संरक्षित समाज कृषिक्षेत्रस्य उल्लेखं कुर्वन्त्या अमुनोक्तं यत् द्वाविंशत्युत्तरद्विसहस्रतमवर्षं यावत् कृषकाणाम् आयं द्विगुणीकरणं प्रशासनस्य प्रतिबद्वता वर्तते कृषिक्षेत्राय षोडशस्त्रीयकार्ययोजना योजनान्विता अस्ति जलसमस्यानां सम्मुखीकुर्वाणानां शतजनपदानां व्यापकोपाया निर्माष्यन्ते इत्यपि प्रस्तावितो वर्तते वित्तमन्त्रिणा निगदितं यत् प्रशासनम् अन्दातृः उर्जादातार विनिर्मास्यते धन्यलक्ष्मीयोजनान्तर्गतं समंचितभण्डारणाय ग्रामाणामन्नानि विशेषकेन्द्रेष स्थापयिष्यन्ते येषां केन्द्राणां सब्चालनं महिला विधास्यन्ति अग्रे तया स्पष्टीकृतं यत् नवीनशिक्षानीते घोषणा शीघ्रमेव विधास्यते उच्चशिक्षा सर्वोच्चरीत्या विवर्धिष्यते समाजे वंचितवर्गाणां विद्यार्थिनां कृते उपाधिस्तरीय ऑनलाइन इति सब्जालीय कार्यक्रम अपि समारप्स्यते उच्चशिक्षाजगति राष्ट्रियारक्षिविश्वविद्यालयस्य राष्ट्रियफोरेंसिकविज्ञानविश्वविद्यालस्य अपि प्रस्तावो निर्मितो वर्तते निर्भयादष्कर्मम् निर्भयासामूहिकदष्कर्महत्ययो प्रकरणे चतुर्णामू अभिय्क्ताना मृत्युदण्डस्य नवीनतिथये तिहाडकारागाराधिकारिण पटियाला हाउस इति न्यायालये गमिष्यन्ति कारागारस्य महानिदेशकेन संदीपगोयलेनोक्तं यत् राष्ट्रपतिना अभियुक्तस्य विनयक्मारशर्मण दयायाचिकानिस्तीकरणे त पिदक्षेपोऽयम् उत्थापित

केन्द्रियविधिन्यायमन्त्रिणा रविशंकरप्रसादेनोक्तं यत् प्रशासनम् अधिनियमस्य विषये सर्वशंकासमाधानाय द्रीकरणाय च तत्परं वर्तते दिल्ली निर्वाचनम् दिल्लीविधानसभानिर्वाचनप्रचाराय केवलं षट्टदिनानि अवशिष्टानि सन्ति सर्वेभ्य राजनीतिकदला उवकीयमतदातृणा समीपे प्रापणाय प्रयासा तीव्रीकृता सन्ति

कोरोनाविषाणु एयरइण्डिया इत्यस्य द्वितीयं विशेषं विमानं चीनदेशस्य वुहान इति स्थलात् कोरोनाविषाण्य्रस्तानां भारतीयजनानामापद्द्वाराय दिल्लीत उड़डीयते